महाराष्ट्रे शिवसेना कांग्रेस् राष्ट्रवादि कांग्रेस्दलानि समवेतत्वेन प्रशासनं रचयिष्यन्ति एतदर्थं दलै प्रयासा तीव्रीकृता

झारखण्डे भवि विधानसभा निर्वाचनस्य चतुर्थचरणाय नामांकन पत्र प्रपूरणस्य प्रक्रिया अद्य समारब्धा भारत बांग्लादेश भारत बांग्लादेशयोर्मध्ये प्रथमा क्रिकेट् निकष स्पर्धा कोलकाताया ईडन गार्डन क्रीडाङगणे प्रवर्तते स्पर्धायामस्याम् प्रथमं तावत् पाटलवर्णस्य कन्द्कस्य प्रयोगो भवति पणकं विजित्य बांग्लादेश प्रथमं क्रीडति अहोरात्रं समनुवर्तमानस्या क्रीडाउयात्मिकाया क्रिकेट श्रंखलाया अस्या द्वितीयं द्वन्द्वमपि अद्य रात्रौ एव समायोजयिष्यते

एतदर्थं दलै प्रयासा तीव्रीकृता शिवसेना प्रमुखेण उद्घव ठाकरे वर्येण अद्य म़ाबय्यां स्वीयावासे दलविधायकै समं समाचरितम्पवेशनम्

केन्द्रीय स्वास्थ्यमन्त्री डॉ हर्षवर्धन ई सिगोरेट इति विद्युत्वर्तिको त्पादने विनिर्माणे एतदा यात निर्यात क्रय विक्रय भण्डारण विज्ञापनेष च प्रतिबन्ध विषयकं विधेयकमद्य राज्यसभायां प्रस्तुतवान एतद्दष्प्रभावेन जनानां रक्षणं हि अस्य विधेयकस्य उद्देश्यः विद्यते तत्रैव केन्द्रीय पर्यावरण जलवायू परिवर्तन वनमन्त्री च प्रकाश जावडेकर लोकसभायां प्रश्नकाले प्रत्यपादयत् देशे प्रत्यहनि प्राय त्रिशत्टनमित सकृद्पयक्त आकरद अवकररूपम् अधिगच्छति अस्य अत्यहपांश एव प्नर्प्रयोगार्थं संकलिनं भवति अवशिष्टानां सर्वेषामपि एतेषाम् आकरदानाम् संकलनं महत्कठिन कर्म केन्द्रीय पर्यावर मन्त्रिणा एतदर्थं व्यवहार परिवर्तनम् हि आवश्यकं सम्दीरितम्

कार्यमिद गतमासे एव पूर्णतां गतम् लिखितोत्तरे रेलमन्त्रिणा एतदपि संसूचितम् यत् आदर्श स्टेशन योजनामाध्यमेन चितानां त्रिपंचाशदधिक द्वादश शतं रेलस्थात्रणां नवीनीकरणलक्ष्यम् अस्मिन्नेव वित्तवर्षे प्रप्रयिष्यते केन्द्रप्रशासनेन पुनर्व्याहतं भारतीय रेल विभागस्य निजीकरणं नैव विधास्यते

रेलविभागे प्रशासनस्य एकाधिकार नियन्त्रणं च अम्ना सविशेषम् उदीरितम् लोकसभा देशस्य विभिन्न भागेषु केंसर संस्थानानां प्रतिष्ठापन परा पंचत्रिंशत्प्रस्तावा प्रशासनेन अभ्युपगता एतदन्तर्गतं प्रत्येकस्मिन् प्रान्ते एकं कैन्सर संस्थानं एकं कैन्सर केयर केन्द्रं चापि प्रतिष्ठापयिष्येते लोकसभायां प्रश्नोत्तरकाले राज्यस्वास्थ्यमन्त्री अश्विनी कुमार चौबे सूचनामिमां प्रख्यापयत्

वक्तव्यमिदं लोकसभायां राज्य पर्यावरण मन्त्री बाबुल सुप्रियो प्ररण्यापयत्